नूतनत्वेन प्रतिष्ठांगतस्य प्रदेशस्य स्थिति समीक्षिता

उच्चतम न्यायालय उच्चतमन्यायालयो ब्रूते त् कतिपय प्रतिबन्ध प्रवर्तनेन समं संविधानस्य एकोनविंशति संख्याकानुच्छेदान्तर्गतं अन्तर्जाल सेवा अस्मदीय मूलाधिकारत्वेन प्रतिष्ठापितास्ति न्यायालयेनाद्य केन्द्रशासितप्रदेशे जम्मू कश्मीरे प्रवर्तितानां सकलानामपि प्रतिबन्धादेशानां समीक्षा प्रतिवेदनं सप्ताहाभ्यन्तरे एव प्रस्तोत् जम्मूकश्मीर प्रशासनं समादिष्टम्

यात्राया द्वितीये हनि अद्य इमे राजदता विभिन्न शिष्टमण्डलै सार्धं मन्त्रयिष्यन्ति जम्मुकश्मीरे प्रवर्तमान स्थितिविषये तेषां विचारा ज्ञास्यन्ति राजदूतानां सविशेषाग्रहानुगुणं प्रशासनेन यात्रेयं समायोजिता ध्येयमस्ति यत् जम्मूकश्मीरे पुन प्रवर्तितं सामान्य जन जीवन शैलि सम्बद्ध ं विस्तुत सूचना संकलनं उद्दिश्य यात्रेयं समनुष्ठितास्ति

उपराष्ट्रपति उपराष्ट्रपति एम वेंकैया नायड् प्रत्यपादयत् यत् न कापि भाषा सम्प्रदाय दुष्ट्या धर्माधारेण च अवलोकनीया तेनोक्तं यत् प्राचीनसाहित्यप्रन्था वेदा उपनिषदानि च न कस्मैश्विदपि समुदाय विशिष्टाय समुद्ध्रतानि सन्ति प्रत्युत मानव यात्रस्य हितकारिणो कर्तव्याकर्तव्यबोधकाश्च इमे प्राचीन साहित्य ग्रन्था इति उपराष्ट्रपति अद्य नागपुरे समायोजितस्य ए आई ओ सी इति ऑल इण्डिया ओरिएण्टल कॉन्फ्रेन्स इत्याख्यस्य सम्मेलनस्य उद्घाटनानन्तरं सम्भाषते स्म उपराष्ट्रपति सबलं न्यगादीद् यत् संस्कृतभाषाम् आधिक्येन जना पठेयु पठित्वा लाभान्विताश्च स्यु एतदर्थं एतस्या भाषाया प्रशिक्षणं सरलविधिना भवेत् अत्र औद्घाटनिकसत्रे केन्द्रीयमन्त्री नितिनगडकरी महाराष्ट्रस्य ऊर्जामन्त्री डॉ नितिन रॉतश्च उपस्थितौ आस्ताम् भारतस्य शिक्षाप्रणाल्यां परिष्कारस्यावश्यकता उपराष्ट्रपतिना सविशेषम्दीरिता